कोविड संक्रमणत मृतकानां संख्या येष् येष् एकादश राज्येष् केन्द्रशासित प्रदेशेष् च समेधन्ते तत्र तत्र तत्कालप्रभावेण स्रक्षोपायानां प्रवर्तन पूर्वकं मानक दिङ्निर्देशानां स्द्रढतया परिपालनमपि समादिष्टमस्ति एतेष् राज्येष् महाराष्ट्र पंजाब कर्नाटक दिल्ली हरियाणा छत्तीसगढ प्रभृतीनि समाविशन्ति मंत्रिमंडलीय सचिव राजीव गौबा ह्य समेषामपि राज्याणां केंद्रशासित प्रदेशानां च मुख्य सचिवआरक्षि महानिदेशक स्वास्थ्य सचिवध्यसाकं समायोजितं उच्चस्तरीयमेकं समीक्षोपवेशनं अध्यक्षितवान् उपवेशने प्रतिपादितं यत् टीयर टू टीयर थ्री चेति नगर साकमेव अर्द्ध नगरीय क्षेत्रेष् सद्य एव कोविड संक्रमण प्रकरणानि समेधमानानि सन्ति अस्य संक्रमणस्य ग्रामीणक्षेत्रेष् प्रसारणेन स्वास्थ्यस्य आधारिक संरचनां समेत्य स्थानीय प्रशासवेष् अपि भूशं आपीड वर्धिष्यते

श्री गौबा राज्य मुख्य सचिवान् प्रत्यपादयत् यत् ते कोविड प्रकरणानां नियन्त्रणाय यथाबलं यथायथं चप्रयासं कुर्यु असौ प्रावोचत् यत् अस्मिन् कार्ये केन्द्र प्रशासन पक्षत संसाधनानि सहयोगश्च पूर्णतोदृशा उपपादयिष्यन्ते

स्वास्थ्य मंत्रालयो ब्रूते यत् विगत चतुर्विंशति होरास् त्रि णवति सहस्रोत्तर तत्रिंशल् लक्ष मितेभ्य लाभार्थि जनेभ्य सूच्यौषधमस्ति वितरितम्

कोविड महामारी त स्वस्थीभूय मनानां परिमिति प्रतिशतं दशमलवोत्तर त्रि षडधिक त्रि णवति मिता जातास्ति

अस्मिन् समये देशे सक्रिय रोगिणां आहत्य संख्या अष्ट पञ्चाशत् सहम्रोत्तर षड् लक्षाधिका वर्तते

अनेन साकमेव साम्प्रतं यावत् संक्रमितानां जनानाम् आहत्य संख्या त्रयोविंशति लक्षाधिक एककोटितोऽप्यधिका जातास्ति

तेनोक्तम् यत् विगत षड्वर्षेषु द्वि अर्बुद संख्याका सामान्य विद्य्द्दीपा एलईडी दीपा अर्थकारेण परिवर्तिता

चिकित्सका तस्य स्वास्थ्य निभालनं प्रतिपलं क्र्वन्तो वर्तन्ते

ध्यानास्पदमस्ति यत् राष्ट्रपते हृदयस्य शल्यक्रियो पचार जात आसीत

ढाकायां बांग्लादेशस्य राजमार्ग मन्त्रिणा ओबेद्ल कादिरेण निगदितं यत् पूर्णपिधानस्य निर्णय कोरोणा महामार्या द्र्तगत्या वर्धमानत्वात् स्वीकृत मन्त्रिणा आशा प्रकटिता यत् जना सम्यक् तया स्रक्षाया उपायान् स्वीक्य् इति बांग्लादेशे श्क्रवासरे एवएकोन सप्तति शत जना रोगेण अनेन ग्रसिता अभवन् मोदी असम भाजपा दलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्रमोदीपूर्वोत्तरस्य उग्रवादि संघटनानि अध्यार्थयत् यत् तानिहिंसाया मार्गमपहाय आत्मनिर्भर असमस्य निर्माणे योगदानं कुर्यु अमुना प्रोक्तं यत्एनडीएसंयुते प्रशासनंराज्ये स्थायि शान्ति संधारणार्थं कार्य क्रुते अस्य परिणामबोडोलैंड मध्ये विगत सार्धेक वर्षेषु द्रष्टुं शक्यते अम्ना उग्रवादि समूहा अध्यार्थितासन्ति यत्सामाजिक जीवनस्य मुख्य धारायां प्रत्यावर्तन कुर्यु असमेतामुलपुर मध्ये एकां निर्वाचनिकीं जनसभा संबोधयता प्रधानमन्त्रिणा आरोपा आरोपिता यत् असमे कांग्रेस शासनस्य अवसरे हिंसायाबम्ब विस्फोटकानां शस्त्रास्त्राणां च प्राबल्यमासीत् असौ एतदपि प्रत्यपादयत् यत् प्रशासनं असम साहमत्यं क्रियान्वयितुं कार्यं कुरुते श्रीमोदी न्यगादीत् यत् राज्यस्य जना विकासं स्थर्टी शान्तिंथ्रातृत्वं सौहार्दं च समीहन्ते अथ च असौ प्रावोचत् यत् हिंसाअस्थिरताश्च न कदापि सहिष्यन्ते प्रधानमंत्री असमे निज विगत नध्यीचनिक जनसभायां प्रोक्तवान् आसीत् यत् एनडीए प्रशासनं समाजस्य समेषामपि वर्गाणां जनानां सर्वतोमुखी विकासाय वचनबद्धमस्ति श्रीमोदी न्यगदत् यत् तस्य प्रशासनेन केनापि सम्दायेनक्षेत्रेण च साकं कदापि भेदभाव नद्याचरित अम्नाइदमपि प्रतिश्र्तं यत् निर्वाचन प्रक्रियाया प्रणानन्तरं राज्येविकास कार्याणि तीव्रीकरिष्यन्ते